जम्मू कश्मीरे जनपद विकासपरिषद द्वितीयचरणस्य त्रि चत्वारिंशत् क्षेत्रेष् मतदानं प्रचलति देशे कोरोनात स्वस्थतामिति समेध्य चतुर्णवतिपरिमिता संजाता साम्प्रतम् यावत् चतुर्दश कोटि परीक्षणानि संबुल्तानि केन्द्रीयमन्त्रिमण्डले सचिव राजीव गाबा अद्य राष्ट्रियापत्प्रबन्धक समिते मंत्रणाया अध्यक्षतां समाचरत्

कृषकै सह उपवेशनात् पूर्व गृहमन्त्री अमित शाह कृषिमन्त्री नेरेन्द्र सिंह तोमर रक्षामन्त्री राजनाथ सिंह भारतीय जनता दलस्य अध्यक्ष जे पी नड्डा च उक्तसन्दर्भे मिथ विचारविनिमयं कृतवन्त इदानीं कृषिमन्त्री वाणिज्योद्योगमन्त्री पीयूषगोयल अथ वाणिज्योद्योगराज्यमन्त्री सोमप्रकाश कृषीवलानां प्रतिनिधिभि समं सम्वाद समचरन्ति ध्येयमस्ति यत् अत्र मन्त्रणायां भ्योपि द्वात्रिशत् कृषिसंघटनानां प्रतिनिधय भागं गृह्हन्ति जम्मकश्मीर जम्मू कर्मीर जनपद विकासपरिषद द्वितीयचरणस्य त्रि चत्वारिशत् क्षेत्रेष् मतदानं प्रचलति अस्मिन् पंचविंशति क्षेत्राणि कर्मीर उपत्यकाया अथ अष्टादश क्षेत्राणि जम्मूसम्भागस्य वर्तन्ते अस्मिन् मतदान चरणे नवति सहम्राधिक सप्त लक्षतोप्यधिका जना एकविंशति उत्तर त्रिशत् प्रत्याशिनां राजनीतिक भागयस्य निर्णयं विधास्यन्ति

द्विवादनं यावत् राज्ये अष्ट त्रिंशत् दशमलव द्वि नव प्रतिशतं मतदानस्य सूचना समधिगता अपरत्र बृहत् हैदराबाद नगर निगम निर्वाचनाय अपि मतदानानि प्रचलन्ति कोरोणासंक्रमणस्य दिशानिर्देशानां दुढ़तया पालनपुरस्सरं तत्र मतदानानि प्रचलन्ति चतुर्जनपदेष् एकोत्तर शताधिक नवसहस्रं मतदान केन्द्राणि तत्र प्रतिष्ठापितानि सन्ति सत्तारूढ़ तेलंगाना राष्ट्रिय समिति दलं संभागस्य सर्वेष् सार्ध शत आसनेष् तत्रैव भाजपादलं उनपंचाशदधिकशत आसनेष् स्पर्धते ध्येयमस्ति यत् एतन्निर्वाचने षट् सप्तति पंजीकृतानां प्रत्याशिनाम् अथ पंचदशेत्तर चत्ःशतं स्वतन्त्र प्रत्याशिनां राजनीतिक भाम्य निर्णयो विधास्यते कोरोना भारतेन कोरोनासंक्रमणं विरुध्य प्रवर्तिते युद्धे महत्वपूर्णा पदक्रमा समुत्थापिता परिणामस्वरूपं विषाणो नूतनानां प्रकरणानां नियन्त्रणे सफलता अधिगता अनुक्रमं चतुर्विंशतिदिवसेभ्य संक्रमणस्य अभिनवप्रकरणानि प्रतिदिनं पंचाशत् सहस्रतो न्यूनानि पुष्टिंगतानि विगते अहोरात्रे प्राय एकत्रिंशत् सहस्रमितानि कोरोनाप्रकरणानि समंकितानि यद्यपि समानसमये एव दव्यशीत्युतरचत्ःशतं संक्रमणप्रस्ता दिवगता अत्रातरे द्विचत्वारिशत्सहस्रतोप्यधिका रोगपीडिता चिकित्सावकाशं प्राप्ता एतदतिरिच्य अद्यावधि देशे प्रायेण नवतिसहम्राधिक अट्टाशोति लक्षसंख्याका जना महामार्या संक्रमिता संवृत्ता स्वस्थतामितिधापि समेध्य चत्र्णवतिपरिमिता संजाता इत्यं भारते सक्रमणप्रस्तानाम् अपेक्षया स्वस्थीभूतानां संख्या विशगृणिता वर्तताध्येयमस्ति यत् वर्तमाने अधिदेशं संक्रमिता केवलं षट्रशताधिक पंचत्रिशत्सहम्रोत्तर चतलक्षमिता एव अवशिष्टा सन्ति स्वास्थ्यमंत्रालयानसारि शिष्टेष नवरोगिष् अष्टसप्नतिमितानि नवप्रकरणानि दिल्ली महाराष्ट्र केरल पश्चिम बंगाल हरियाणा राजस्थान प्रभृतिष् राज्येष् एव अंकितानि सन्ति

इत्थं इदानीं यावत आहत्य भारते पंचाशत सहस्रोत्तर त्रयोदशाधिक चतर्दश कोटि संख्याकानि कोरोनापरीक्षणानि संजातानि

दृश्य श्रव्य प्रणात्या असौ अत्रोपवेशने सहभागम् आवहत् तमिलनाड् केरल राज्ययोः दक्षिण वर्तिष् तटीय क्षेत्रेष् प्रवर्तमानां चक्रवात स्थितिं समीक्षित्ं श्रीगाबावर्येण मन्त्रणेयं आचरिता अत्रोपवेशने तमिलनाड़ केरल राज्ययो सचिवप्रमुखौ लक्ष्यदीपस्य परामर्शदः अपि च विभिन्नानां मन्त्रालयानां सचिवा समुपास्थिता अवर्तन्त अत्रान्तरे काचिदापि अवांछित स्थितिं सम्मुखीकरण परा स्वीय सज्जता विभागै सम्प्रस्तुता

इद हि भारतस्य प्रथमं सीमासुरक्षाबलं वर्तते गतशताब्दस्य पंचषष्टितमे वर्षे भारत पाकिस्तानयोर्यघ्ये संजातस्य यद्धस्य सद्योड़न्तरं भारतीय संसदा उक्तबलसम्बद्ध अनच्छेद दिसम्बरमासस्य आदिमे दिनांके पारित आसीत दिवसोपलक्ष्ये अद्य नवदेहल्या सीमासरक्षाबलस्य परिसरे आयोजिते कार्यक्रमे उक्तबलनिदेशक राकेश अस्थाना राष्ट्र समाश्वासयत् यत् राष्ट्सरक्षायै सीमास्तरक्षाबलं सुदुढं समाचरति अपि च पाकिस्तानेन विधीयमाना अवैधप्रवेशप्रयासा बलेन दुढतया विफलीकरोति

एइस दिवस अद्य विश्व एइस दिवस अस्ति एतत् संक्रमणरोगं प्रति जनजागरूकता विस्तारम् उद्दिश्य दिनमिदं मान्यते ऐक्यभावनया एच्आईवीत्याख्यस्य रोगस्य उन्मूलनाय अथ एतद्रोगेण दृष्पीडितानां साहाव्याथैं जनान् प्रेरयति अयं दिवस विश्वस्वास्थ्य संघटनान्गुणं गतवर्षे सम्पूर्णेपि विश्वे अशीतिलक्षोत्तर त्रिकोटि मानवा उक्तरोगेण आक्रान्ता आसन् अवधेयमस्ति यतु भारतेन प्रथमं तावतु गतशताब्दस्य द्विनवतितमे वर्षे राष्ट्रिय एड्स नियंत्रण कार्यक्रमस्य समारम्भ कृत आसीत् अनन्तरं देशेन एतत् संक्रमणं विरुध्य जनजागरणाय अथ एतन्निरोधाय महत्वपूर्णाः पदक्षेपाः समृत्थापिताः आसन् आकाशवाण्या सह साधिते विशिष्ट साक्षात्कारे भारते कार्यलम्नेन संयुक्तराष्ट्रस्य एड्सनिदेशकेन बिलाल कमारा इत्यनेन एड्सरोगस्य नियंत्रणाय भारतस्य भूमिका प्रशंसिता